भारत स्थ ईरानीयो राजदृत डॉअली चेगेनी अब्रवीत् यत् सोलेमानिनो वधाऽनन्तरम् ईरानामेरिकयोर्मध्ये प्रवृद्धाम् आततिम् उपशमयित्ं भारतस्य कश्चिदपि शान्ति प्रयास ईरानेन स्वागती करिष्यते

एतद् विषयको निर्णयश्च गतदिवसे नवदिल्ल्यां सम्मिलितया आर्थिक विषयिण्या केन्द्रीय मन्त्रि परिषदा गृहीत

भारतस्य प्रगतौ भिन्न विधेष् राष्ट्रेष् प्रवसतां भारतीय जनानाम् अन्त्तमानि अवदानानि संस्मर्त्यूं दिवसोऽयं प्रतिवर्षमायोज्यते गत शाताब्द्या पञ्चदशे वर्षे एतस्मिन्नेव दिवसे महात्मा गान्धी दक्षिणाफ्रीकात स्वदेशं प्रतिनिवृत्त आसीत् एतच्छताब्द्या तृतीये वर्षे दिवसोऽयं विदेश मन्त्रालयेन प्रतिष्ठापित

देशस्य अष्टाविंशतितम स्थलसेना प्रमुखत्वेन पदभास्ग्रहणाऽनन्तरं तस्य सेयं प्रथमा सियाचीन यात्रा विद्यते जम्मूकश्मीरारक्षिमहानिदेश सुरक्षोपवेशनम् केन्द्र शासितस्य जम्मूकश्मीर प्रदेशस्य आरक्षि महानिदेशक दिलबाग सिंह तत्रत्यान् रक्ष्यधिकारि जनान् संचेतितवान् यत्तत्र प्रदेशे उपद्रवि तत्त्वानि शान्ति भव्जयित्म् अवसरान् प्रतीक्षन्ते अत त सतत सावधान आव्यम् स गतदिवसे कश्मीरस्य शोपियां प्लवामा जनपदयो निरीक्षण यात्रा क्रमे तत्रत्यां सुरक्षा स्थितिं समीक्षते स्म ईरानम् भारतम् शान्ति भारत स्थ ईरानीयो राजदूत डॉअली चेगेनी अब्रवीत् यद् ईरानीय सेनापते कासिम सोलेमानिनो वधाऽनन्तरम् ईरानामेरिकयोर्मध्ये प्रवृद्धाम् आततिम् उपशमयित् भारतस्य कथ्डिदपि शान्ति प्रयास ईरान प्रशासनेन स्वागतीकरिष्यते

खेलो ग्डिया खेलो इण्डिया इति भारतीय युव क्रीडानां तृतीयं संस्करणं श्वो गुआहाट्यां समारप्स्यते